जयशंङ्कर विदेश मन्त्री एस्जय शङ्करो ब्रूते यद् भारतम् एकस्मात् प्रतिवेशि देशात् चिराद् विशिष्टमाहवानं संमुखीकुर्वाणं विद्यते अपि च तद् आहवानं तावदवधि यथावस्थं स्थास्यति यावदवधि स प्रतिवेशी सामान्यतया न व्यवहरित आतंकवादं च प्रतिरुणद्वि श्रीजयशंकरेण स्पष्टीकृतं यत् प्रश्न सप्तत्यधिक द्विशत तम्या सांवैधानिक धाराया अपसारणं नैवास्ति अपि तू पारेसीम प्रायोजित आतंकवाद विद्यते इमं च आतंकवाद विषयम् अधिकृत्य आदौ देशद्वय मध्ये संभाषणम् अपेक्षितमस्ति विदेश मन्त्रिणा पुनर्व्याहतं यत् पाकिस्ताधिकृत कश्मीरो भारतस्य अभिन्नमङ्गं विद्यते अपि च नवदेहली विषयमेनमधिकृत्य न्यायम् अभिवाञ्छति राजनाथसिंह प्रतिरक्षा मन्त्री राजनाथ सिंह अव्रवीत् यद् भारतं पञ्च विंशत्यधिक द्विसहस्र तम वर्षं यावत् षड् विंशत्यर्वद डॉलर मुद्रात्मकस्य स्वीय प्रतिरक्षोद्योगस्य लक्ष्यं समवाप्स्यति स गतदिवसे नवदिल्ल्याम् आयोजिते एकस्मिन् कार्यक्रमे भारतीय प्रतिरक्षा सामग्री निर्मातु समवायानां वृन्दं समुद् बोधयति स्म नीत्यायोग प्रमुख नीत्यायोगस्य मुख्य कार्यकार्यधिकारिणा अमिताभ कान्तेन कथितं यद् देशस्य प्राक्तनम् आर्थिक वृद्धि स्तरं पुन प्राप्तुं कृषि निर्यात क्षेत्रे संरचना गत परिष्कार समपेक्षितो विद्यते स गतदिवसे मुम्बय्याम् एकस्मिन् कार्यक्रमे जनान् सम्बोधयति स्मा आन्ध्रप्रदेशनौकादुर्घटना आन्ध्रप्रदेशे पूर्वीय गोदावरी जनपदस्थे देवीपत्तने गोदावरी नद्यां गत रविवासरे दुरापन्नायां नौका निमज्जन दुर्घटनायां मृतानां संख्या ऐधत्वा पड़िंवशति संवृत्तास्ति स्रोतोभि संसुचितं यत् इदानीं यावत् षड् विंशति शवा अधिगता सन्ति अवशिष्टानां विलुप्त जनानामु अन्वेषणोद्धाराभियानं सम्प्रत्यपि प्रवर्त्यते मुख्यमन्त्रिणा वाईएस् जगन्मोहन रेड्डिना अस्या द्र्घटनाया उच्च स्तरीयान्वीक्षणार्थं समादिष्टम्